जीएस्एल्वी मार्क थ्री इतिग्रुतर वाहनमारूढं चन्द्रयानमिदम् अद्य आन्ध्रप्रदेशस्य श्रीहरि कोटा स्थितात् सतीश धवनाऽन्तरिक्ष केन्द्रात् अपराह्ने त्रि चत्वारिंशन्निमेषोत्तरे द्वि वादने प्रक्षेपणार्थं प्रदीपयिष्यते इसरो इति भारतीयाऽन्तरिक्षाऽन्सन्धान संघटनस्य वैज्ञानिकै विज्ञापितं यद् एतस्य चन्द्रयानस्य प्रक्षेपणार्थं विंशति होरा पूर्वं गतसायं पादोन सप्त वादने प्रारब्धा प्रतीप गणना सम्प्रति सम्यक् अनुवर्तते कर्णाटकम् राजनैतिकसंकटम् कर्णाटके शासनाधिरूढं कांप्रेस जेडीएस् संयुति शासनम् अच्छ राज्य विधानसभायां शक्ति परीक्षणं संमुखीकुरुते एतत्परीक्षणेन सहैव तत्र राज्ये चिराद्न्वर्तमानं राजनीतिक संकटं सम्प्रति समुपशमितं स्यादित्याशास्यते अत्रान्तरे शासनाधिरूढ संय्ति दलं विपक्षस्थं भाजपावन्दं च स्व स्व पक्षे विधायकान् समाक्रष्ट् सर्वात्मना प्रयतमाने स्त उभाभ्यामपि दलाभ्यां स्व स्व विधायक वृन्दस्य मन्त्रणोपवेशनं विगत दिवसे बेंगलूरौ विहितम् उत्तरप्रदेश विद्यन्निपात उत्तरप्रदेशे सद्यो द्रापन्नायां भीषण विद्युन्निपात घटनायां द्वात्रिंशज्जना मृता त्रयोदश च क्षता संवृत्ता सूच्यन्ते तत्रत्येन शासकीय प्रवक्त्रा ज्ञापितं यदेतस्यां विपदि बलीभूतेष् जनेष् प्रत्येकं सप्त कानप्र फतेहपुराभ्यां पब्च झांसीत चत्वार जालोनात् त्रयो हमीरपुरात् द्वौ गाज़ीपुरात् एकैकश्च जौनपुर प्रतापगढ कानपुरग्राम्यवसति चित्रकूटेभ्य संसूचिता सन्ति

शीलादीक्षित परह्य दिवंगताया दिल्ल्या पूर्वमुख्यमन्त्रिण शीला दीक्षित महाभागाया अन्त्येष्टि गतदिवसे नवदिल्लीस्थे निगमबोध घट्टे राजकीय सम्मानेन साकं सम्पादिता अवसरेऽस्मिन् अशेष देशस्य विभिन्नानां राजनैतिक वृन्दानां वरिष्ठा नेतार अनुभवि नेत्र्यै अन्तिमं श्रद्धाजलिं समर्पयित् समवेता अवर्तन्त

भारतीयं क्रीडक दलम् आगामिषु दिवसेषु वेस्टइण्डीजं सम्प्राप्य आतिथेयेन क्रीडक वृन्देन साधं विंशति प्रतिविंशति क्षेप चक्रीयै द्वन्द्वै स्वीयाभियानं प्रारप्स्यते तदन् दलमिदम् एकदिवसीयं निकषीयं च द्वन्द्वमपि संमुखीकरिष्यति